चत्र्दिवसात्मकस्य सूच्यौषध उत्सवस्य श्भारम्भः हयः अभवत्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 प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य पंचविंशति दिनाइके आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् प्रकटयिष्यति

कोविड ओपनिंग प्रिय श्रोतार कोरोनामहामारींविरुध्य राष्ट्रम्ऐक्य आवनया य्द्ध्यते

निर्यात प्रतिबन्धः देशे कोविड महामार्याः जातां स्थितिम् अभिलक्ष्य रेमडेसिविर स्रच्यौषधस्य तस्य घटकौषधानां च निर्यातं प्रतिषिदधीकृतम् स्वास्थ्य मन्त्रालयेन प्रतिपादितं यत् कोविड महामार्याः प्रकरणेष् तीव्र वृद्धिः दरीहष्टा इदानीम् अशेषे हि दशे एकादशलक्ष मितोऽपि अधिका जनाः कोरोना विषाणोः संक्रमिताः सन्ति अपि च आगामिष् दिनेष् अपि संक्रमितानां जनानां संख्यायां वृद्धेः आशंका अस्ति तत्र एषां औषधानां महती आवश्यकता भविष्यति मन्त्रालयेन रेमडेसिवर इत्यस्य सर्वे स्वदेशी निर्मातारः परामृष्टाः यत् तैः सर्वैः स्वकीयानाम् अन्तर्जालपटले ओषधीनां भण्डारस्य वितरकानां च विवरणम् अवश्यमेव दीयताम् अनेन ओषधीनां कुयणे सौविध्यं भविष्यति अवधेयास्पदम् अस्ति यत् भारते सप्त संस्थाः रेमडेसिविर सृच्यौषधस्य उत्पादनं करिष्यन्ति येषां मासिक उत्पादनस्य क्षमता अशीति सहस्रोत्तर अष्ट चत्वारिंशत् लक्षं प्रतिघटकम् अस्ति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

एष् सप्तचत्वारिंशत् सहस्रोतर पञ्चविंशति लक्ष जनाः प्रथमं वारं सुच्यौषधं प्राप्तवन्तः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

क्रीडा वार्ताः इण्डियन प्रीमियर लीग इत्यस्य क्रिकेट श्रृंखलायां हयः चेन्नईनगरस्थे एमए चिदम्बरम् इति क्रीडाङ्गणे कोलकाता नाइटराइडर्स इति दलेन सनराइज़र्स हैदराबाद इति दलं दशधावनांकेः पराजितम्